देशे कोविड ऊनविंशति इत्यस्याः संक्रमणात् जातां स्थितिम् अभिलक्ष्य अग्रिममासे प्रस्ताविता यूजीसी राष्ट्रिय पात्रता परीक्षा ने इति स्थगिता रक्षामन्त्रिणा राजनाथ सिंहेन सैन्य चिकित्साकर्मिणः कोविड संक्रमणेन पीडितानाम् उपचारार्थं निर्दिष्टाः अद्य अखिले हि देशे रामनवमी इत्येद पर्व हर्षेण सोल्लासेन च परिपाल्यते

एतदर्थं निवेद्यते यत् असावधानतां मा व्यवहरन्तु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

प्रधानमन्त्री सम्बोधन प्रधानमन्त्रिणा नरेन्द्र मोदिना सबलं प्रतिपादितं यत् देशः कोविड ऊनविंशति इत्यस्याः द्वितीय तरंगोपरि दृढ़संकल्पेन साहसेन सन्नद्वतया च विजय करिष्यति तेन प्रतिपादित यत् राज्यैः पर्णपिधानम् अन्तिमविकल्परूपेण एव स्वीकर्तव्यम्

सः प्रावोचत् यत् आर्थिक स्वास्थ्यं देशवासीनां च स्वास्थ्यं द्वे अपि महत्वपूर्णे स्तः प्रधानमन्त्रिणा कथित देशस्य नैकेषु भागेषु प्राणावयोः अभ्यर्थनायां वृद्धिः दृष्टा एतदर्थं केन्द्रीय सर्वकारः राज्यसर्वकाराश्च निजीक्षेत्रकैः साकं मिलित्वा प्राणवायोः उपलब्धतां सुनिश्चीकत्ी प्रयासरताः सन्ति सममेव सर्वकारेण प्राणवायोः आपूर्तये परिवहनस्य विशेष सौविध्यस्य अपि विकासः क्रियते तेन उक्तं यत् शीघ्रमेव राज्येष् नूतनानि प्राणवाय् संयन्त्राणि भविष्यन्ति सहैव एकलक्ष नवीन प्राणवायु कोषाः राज्येभ्यो प्रेषयिष्यन्ते

अनेन रेमडेसिविर औषधस्य प्राप्तिः अपल्पमूल्ये भविष्यति यत् रोगीणां कृते साहाय्यं भविष्यति राजनाथ सिंह रक्षामन्त्रिणा राजनाथ सिंहेन सैन्य चिकित्साकर्मिणः कोविड संक्रमणेन पीडितानाम् उपचारार्थं निर्दिष्टाः गतदिने रक्षामन्त्रिणा देशे कोविड संक्रमणस्य स्थितिम् अभिलक्ष्य सैन्यबलानां सन्नद्वताम् उद्शिय एकम् उपवेशनं कृतम् अत्र रक्षामन्त्रिणा निर्दिष्ट यत् स्थानीय सैन्याधिकारैः राज्यानां मुख्यमन्त्रिभिः साकं मिलित्वा सहायतार्थं प्रस्तावः दीयताम रामनवमी अद्य अखिले हि देशे रामनवमी इत्येद् पवं हर्षेण सोल्लासेन च परिपाल्यते रामनवमी इत्येतद् पवं भगवतः रामस्य जन्मावसरः अस्ति भगवान् रामः भगवतः विष्णोः सप्तमः अवतारः आसीत्